विगतमासद्वयोरेव औषधीय प्रयोगाय प्राणवायो आवश्यकता सम्पूर्ण देशे वरिवर्ध्य चत्र्ग्णितं जातम्

श्रममन्त्रालयेन विंशति नियंत्रण प्रकोष्ठानां संरचना विहितास्ति

एतदर्थ निवेदयते यत् असावधानतां मा व्यवहरन्त्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 भवन्त भवत्यश्च स्रक्षाया उपायत्रयस्य संकल्पं स्वीकृत्य स्रक्षिता भवन्त् म्खनासिकावरकं सन्धारयन्त् दैहिकदौर्यं परिपालयन्त्र पाणिपादं च यथासमयं प्रक्षालयन्तु औषधं अपि समवधानता अपि

उपवेशनमिदंदृश्यश्रव्य परान्तरजालीय माध्यमेन चिकित्सकै औषधनिर्मातृ समूहै सह आयोजनानन्तरं तृतीयतममस्ति

राजनाथ कोविडोपवेशनम रक्षामंत्री राजनाथसिंहः कोविडमहामारीम् आलक्ष्य सैन्योषधदलानि निर्दिष्टवान् यत् जनसामान्यानां सहायतायै सन्नद्धता स्यात् तेन एतदपि आदिष्टम् यत् अतिरिक्ततया अपि सन्नद्धतायै आवश्यकता अस्ति चेत् आचरणीयम्

प्राणवायो उपलब्धतायामपि सैन्यसहयोगाय रक्षामन्त्रिणा अधिकारिभि सह मन्त्रणा कृता विशेषतया रक्षामन्त्रिणा क्षेत्रीयसैन्याधिकारीणां मुख्यमन्त्रिभि सह पारामार्शिक सम्पर्काय अपि दिशानिर्देशा दत्ता क्रोविड अदयतनम् आराष्ट्रे स्वास्थ्यमन्त्रालयान्सारेण विगतचतुर्विशति होरास् सार्धद्विलक्षादधिकानि नूतन कोरोणा प्रकरणानि पृष्टिं गतानि

अस्मिन्नेव काले एकषष्ट्यूत्तरसप्तशताधिक एकसहस्रजनाश्च अनेन रोगेण मृत्य्मपगता

पदोनत्रयोदशकोटि प्राया जना सूच्यौषधं च प्राप्तवन्त स्वस्थतामिति च अपचीय पंचाशीति दशमलव पंच षड् प्रतिशतात्मकं जातम्

एतेषां प्रकोष्ठानां निरीक्षणं श्रमायोगाधिकारिण करिष्यन्ति

ग्रूवासरे तत्र मतदानं भविष्यति प्रात सप्तवादन मतदानम् आरभ्य सार्धषड्वादनं यावत् संध्यापर्यन्तं प्रचलिष्यति सर्वेष् मतदानकेन्द्रेष् ईवीएम इति मतदानोपकरणेन सह पारदर्शितायै वीवीपैट इति यन्त्रमपि स्थापयिष्यते पूर्णपिधानानि कोराणाया कारणेन देहलीसर्वकारानन्तरं तेलंगाना केरला छत्तीसगढादिष् राज्येष् अपि पूर्णपिधानादेश आगत अस्ति अंशत पूर्णत वा

राज्यसर्वकाराय च तेन श्रमिकेभ्य मूलभूत आवश्यकताया पूर्त्यै निर्देश दत्त मनमोहन केन्द्रीयस्वास्थ्यमन्त्रिणा डॉ हर्षवर्धनेन निगदितं यत प्राक्तन प्रधानमन्त्रिण सरदारमनमोहन सिंहस्य स्वास्थ्यस्थितिं स्वयमेव निरीक्षन् अस्ति चिकित्सकानां दलमेकम् अपि अखिलभारतीय आय्र्विज्ञानसंस्थाने श्रीमत सिंहस्य स्वास्थस्थितिं निरीक्षयन् अस्ति स्थिति च प्राक्तनप्रधानमन्त्रिण स्थिरा वर्तते अष्टाशीति वर्षीय डॉ मनमोहनसिंह कोविड रोगेण ग्रस्त अस्ति ह्यस्तनमेव स चिकित्सालयाधीन अभवत् उत्तर प्रदेश उत्तर प्रदेश सर्वकारेण प्रोक्तं यत् राज्ये पूर्णपिधानस्य आवश्यकता नास्ति अवधेयास्पदम् अस्ति यत् गतदिने इलाहाबाद उच्च न्यायालयेन सर्वकाराय पञ्चजनपदेष् पूर्णपिधानस्य निर्देशा प्रदत्ता एष् लखनऊ कानप्र वाराणसी प्रयागराज गोरखप्र जनपदा सन्ति सर्वकारेण प्रोक्तं यत् राज्ये निर्धन जनानां जीविकाम् अभिलक्ष्य पर्णपिधानं न करिष्यते सर्वकारस्य अस्य निर्णयस्य अन्मोदनं च सर्वोच्चन्यायायलयेनापि विहिता अस्ति

इयम् आपूर्ति दिल्ली हरियाणा पंजाब राज्यानां विभिन्नेष् चिकित्सालयेष् क्रियते गतदिने जीवनरक्षक प्राणवायो प्रथमा मात्रा दिल्लीस्थं महा दुर्गा चैरिटेबलट्रस्ट चिकित्सालयं प्रति प्रेषितम्